श्रीमता मोदिना संचार माध्यमानि अध्यर्थितानि यत्तानि जनानां मध्ये सेतुवत् आचरेयु अपि च भिन्न भाषा भाषिण निकटं समानेत् प्रयासान् विदध्यु सेनाध्यक्षो जनरल् बिपिन रावत कश्मीरोपत्यकायां सर्वविध सुरक्षा स्थितिं समीक्षितुम् अद्य श्रीनगरे विद्यते

तेनोक्त यत् देशे सार्ध द्वादश सहस्रमितानि आयुष केन्द्राणि संस्थापयितुं प्रशासनं कटिबद्धमस्ति

तेनोदीरितं यत् प्रशासनं वर्षेस्मिन् चत्स्सहस्र मितानि एतादृशानि केन्द्राणि उद्घाटयितुं सर्वात्मना प्रयतते योगस्य प्रचाराय प्रसाराय च विशिष्ट भूमिकायै अवचितेभ्यो जनेभ्य अद्य नवदिल्ल्यां योग प्रस्कारान् प्रददन् श्रीमोदी अभाषत यत् देशे साधैंक लक्षमितानि स्वास्थ्यारोग्य केन्द्राणि समुद्घाट्यन्ते प्रधानमन्त्रिणा प्रोक्तं यत् योग प्राणायामायुर्वेद बलेनैव स स्वस्थो विद्यते श्री मोदी न्यगादीत् यत् महात्म गान्धी अपि प्राकृतिक चिकित्सायां विश्वसिति स्म अद्यतने योग पुरस्कारार्पण समारोहे प्रधानमन्त्रिणा आयुष प्रणाल्या चिकित्सारतानां नैकेषां ख्यातवैद्यानां नामभि द्वादश प्रैष मुद्रा अपि लोकाय समर्पिता

दृश्य श्रव्य संचारमाध्यमेन नवदिल्ल्यां मनोरमा वार्ता सम्मेलनं संबोधयता श्रीमता मोदिना संचार माध्यमानि अध्यर्थितानि यत्तानि जनानां मध्ये सेत्वत् आचरेयु अपि च भिन्न भाषा भाषिण निकटं समानेतुं प्रयासान् विदध्यु

अनेन चन्द्रयानमेतत् चन्द्रमस भूयोऽपि निकटं गमिष्यति अवधेयमस्ति यत् इसरो इति भारतीयान्तरिक्षानुसन्धान संघटनस्य वैज्ञानिकै अभियन्तृभि च एतदभियानस्य साफल्याय अनारतं प्रयासा विधीयन्ते सेनाध्यक्ष रावत सेनाध्यक्षो जनरल बिपिन रावत कश्मीरोपत्यकायां सर्वविध स्रक्षा स्थितिं समीक्षितुम् अद्य श्रीनगरे विद्यते रक्षास्रोतसाम् अनुसारि श्री रावत उपत्यकायाम् आतते अवैध प्रवेशस्य च अवरोधाय प्रकल्पितां व्यवस्थां नियन्त्रण रेखायां सशस्त्र सैन्यवलानां सज्जां च समीक्षते सप्तत्यधिक त्रिशततमान्च्छेदस्य अपाकरणानन्तरं श्री रावतस्य इयम् आद्या जम्मूकश्मीर यात्रा वर्तते जम्मुकश्मीरमुस्थिति जम्मूकश्मीरे अद्य स्थिति सामान्या अवर्तत परञ्च श्क्रवासरीयं नमाज् इति सामूहिक प्रार्थनाकृत्यम् अभिलक्ष्य अवधानत्वेन उपत्यकायां विशिष्य श्रीनगरे अन्येष् च कतिपय क्षेत्रेष् प्रतिबन्ध प्रवर्तते सार्वजनिक परिवहन व्यवस्था प्रतिबन्धितास्ति परं मार्गेष् निजवाहनानां नागरिकाणां च गमनागमनं दरीदृश्यते उपत्यकायां द्रभाषसेवापि पुनरारब्धास्ति

स्पर्धारम्भश्च भारतीय समयानुसारि सायम् अष्ट वादनाद् निर्धारितोऽस्ति